राष्ट्रपतिः रामनाथकोविंदः नेशनल ऑर्डर ऑफ मेरिट इति सम्मानं प्राप्तवान् विश्व क्रिकेट चषक स्पर्धा मालायाः अनन्तरं भारतीय क्रिकेट दलं अध्ना वेस्ट इण्डीज़ दलं विंशति प्रतिविंशति स्पर्धा मालायां सम्मुखी कर्तम् अस्ति सन्नद्धम् उच्चतम अयोध्या उच्चतम न्यायालयेन गतदिने अयोध्यास्थित रामजन्मभूमि विवादस्य लम्बितोविषये मंगलवासरात् प्रतिदिनं श्रवणादेशः प्रदत्तः सर्वसम्मत्या विवाद समाधानप्रयासानां विफलानन्तरं निर्णयोऽयं प्रदत्तः प्रधान न्यायाधीशस्य रंजनगोगोइनः नेतृत्व घटित न्यायाधीशपीठेन मध्यस्थता समित्या प्रस्तुत प्रतिवेदनान्तरं निर्णयः स्वीकृतः कोविंद अफ्रीकीय देशत्रयस्य यात्रायाः तृतीये चरणे राष्ट्रपतिः रामनाथकोविंदः गिनी देशे वर्तते तत्रत्यां राजधान्यां कोनार्की नगयां राष्ट्रपतेः कोविंदस्य गिनी देशस्य राष्ट्रपतिना एल्फा कोंडे इत्यनेन सह मेलनम् अभवत् अत्रावसरे देशद्रयस्य मध्ये प्रतिनिधि स्तरीये सम्भाषणम् आयोजितम् आयुर्वेद नवीनकरणीयोर्जसा क्षेत्रे देशद्रयेन सन्धिपत्राणि हस्ताक्षरितानि

राष्ट्रपतिः रामनाथकोविंदः नेशनल ऑर्डर ऑफ मेरिट इति सम्मानं प्राप्तवान्

सिगरेट अन्य तम्बाकू उत्पाद राजस्थान संशोधन विधेयक ऐषमः ध्वनिमतेन पारितवान् विधेयकस्य प्रावधानान्सारेण राज्ये ये धूम्रपान केन्द्रं संचालयिष्यन्ति तेषाम् कृते वर्षत्रयपर्यन्तं कारागृहं अपि च एकलक्ष रूप्यकाणां पर्यन्तं दण्डस्य प्रावधानं वर्तते रायबरली लखनऊनगरे केन्द्रीयान्वीक्षणविभास्य एकेन न्यायलयेन रायबेरल्यां उन्नाव दुष्कर्म पीडितया सह दुर्घटना प्रकरणे ट्रकयानस्य चालकेन सह तस्य हायकार्थ सप्त दिवसीय न्यायिक बंधनस्य आदेशः प्रदत्तम्